मुम्बय्यां विधान भवने नवनियुक्त भाजपा सांसदा सम्मेलने सम्भाषणार्थं एकत्रिता अत्र सर्वे नव चिता पंचोत्तर शता भाजपा विधायका उपवेशने सहभागाय समायाता

यूरोपीय संघम् जम्मृकश्मीर यात्रायां यूरोपीय संघ सांसदै भणितं यत् ते आतंकवाद विनष्टम एतदर्थ विहितेष् प्रयासेष् च भारतस्य समर्थने विद्यन्ते तत श्रीनगरे वार्ताहैै सम्भाषणे सांसदै प्रोक्तं यत् स्थायि शान्ति सन्धारणे आतंकवादं च सम्मुखीकरणे भारतस्य सहयोगी रूपेण स्थीयन्ते सप्तत्युत्तर त्रिशत तमीय अनुच्छेदम् अपारकरण तेन भारतस्य आन्तरिक प्रकरणं प्रतिपादितम् सांसदेन रिजार्ड जार्नेकी वर्येणोक्त यत् काश्मीरीय जना शान्तिमीहन्ते शिष्टमण्डलीयां यात्रायां स्वीय व्यक्तव्ये सदस्येन भणितं यत् प्रदेशस्य जना वृत्यवसराणि अपि समीहन्ते राष्ट्रिय एकता दिवस राष्ट्रिय एकता दिवस श्व लौह पुरूष सरदार वल्लभ भाई पटेलस्य वार्षिकीम्पलक्ष्य आयोजयिष्यते एतदथं सज्जा चरमोत्कर्षे प्रचल्यन्ते लक्षाधिका जना अवसरेऽस्मिन विविधेष विभिन्नेषु च कार्यक्रमेषु भागं निर्वक्ष्यन्ति प्रधानमन्त्री नरेन्द्रमोदी सरदार वल्लभ भाई पटेलस्य एकता प्रतिमायां केवडिया ग्जराते च श्रद्धाप्ष्याणि समर्पथिष्यते

गृहमन्त्री अमित शाह नवदिल्लीस्थ मेजर ध्यानचन्द राष्ट्रिय क्रीडांगणे प्रातौ हरित ध्वज प्रदर्शयिष्यति

राष्टपति राष्ट्रपतिना रामनाथ कोविन्देन समावेशि समाजस्य उद्देश्यावाप्तु सामाजिक उत्तरदायित्व सम विश्वविद्यालयेष्वपि सामाजिक उत्तरदायित्वं प्रारब्धुं प्रयासार्थं जना समाहूता नवदिल्लयामद्व जामिया मिलिया सिलामिया विश्वविद्यालयस्य वार्षिक दीक्षान्त समारोह सम्बोधयता तेन भणित यत् विश्वविद्यालयोऽयं विविधतायाम एकताया प्रतीको वर्तते उपराष्ट्रपति उपराष्ट्रपतिना एमवेंकैया नायड़ना वैज्ञानिक शोधानां निष्कर्षा स्थानीय भाषायां जनेभ्य उपपादयित् प्रबलं प्रतिपादितम नागपुरे राष्ट्रिय पर्यावरण अभियन्त्रण शोध संस्थाने नीरी स्तित्र समायोजिताया अन्ताराष्ट्रिय संगोष्ठ्या उद्घाटन कार्यक्रमे प्रवदन् श्री नायडु खि भणितम्

चिदम्बरम् दिल्ल्युच्च न्यायालयेनाद्य कांप्रेस नेतुं पूर्व केन्द्रीय वित्तमन्त्रिणं पी चिदम्बरं आईएनएक्स मीडिया प्रकरणे नवम्बर त्रयोदशं यावत् न्यायिक निग्रहणे प्रेषित